प्रधानमन्त्रिणा मोदिना स्वास्थ्यमन्त्रालयीया दिङ्निर्देशा अनुपालयितुं जना विनिवेदिता केन्द्रप्रशासनं कोरोनाविषाण् अधिसूचित आपत्रूपेण अवर्णयत् राज्यापत् प्रतिक्रिया कोषद्वारा साहाय्यानि उपकल्प्यन्ते अन्ताराष्ट्रियवार्ताष् च देशे एकचत्वादिंत् जनानां मृत्युकारणेन संयुक्तराज्यामेरिकया अभिनवः कोरोना विषाण्ः राष्ट्रियापत्कालत्वेन समुद्वोषित

अध्ना देशो अनेन रूजा प्रभावितानां संख्या एकाशीति जाता अनेन हि द्वौ जनौ कालकवलीभूतौ द्वयो एक दिल्लीत अपरश्च कर्णाटकराज्यीयो अवर्तत अभिनव कोरोनाविषाण् सम्मुखीकर्त् सर्वविधोपाया सन्ति स्वीकृता राजस्थानीय प्रशासनेन अस्य मासान्तं यावत् सर्वाणि सार्वजनिकस्थनानि पिहितानि महाराष्ट्र प्रशासनेनापि चलचित्रगृहाणि उद्यानानि समेत्य सामूहिकस्थलानि पिहितानि अपरत बिहारप्रशासनेन भारत नेपाल सीम्नि जनानां परीक्षणं प्रारब्धम् तत्र हि चिकित्सकीयं दलमपि सम्प्रेषितम् अस्ति उत्तस्प्रदेश प्रशासनेन अपि विद्यालया महाविद्यालयाश्च विहिता

अनेन रूजा पीडितानां उपचाराय पञ्चाशत् अर्बुद डॉलरमित राशि प्रख्यापयिष्यते इदं हि कारोना विषाणुं सम्मुखीकर्तुं वर्तते महत्वपूणोपाय विश्व स्वास्थ्य संघटनेन प्रतिपादितं यत् यूरोप कोरोना विषाणो अभिनव केन्द्र जात